देशे उपभोक्तृणां कृते पलाण्डोः उप लब्धतां वर्धयित्ं प्रशासनेन प्रायशः सपादैकलक्ष मीट्रिकटन परिमितस्य पलाण्डोः आयातार्थम् अनुमोदन विहितम् केन्द्रीयमन्त्रिपरिषद् दिल्ल्यां अनिधिकृतवसतिषु निवसताम् चत्वारिंशल्लक्षप्रायाणाम् जनानाम् कृते स्वभूमिस्वामित्वप्रदानाय वैधप्राग्र्पय्त विधेयक अन्मोदितम् श्रीलंकायां प्राक्तनः राष्ट्रपतिः नवनिर्वाचित राष्ट्रपतेः गोताबाया वर्यस्य भ्राता च महिन्दा राजपक्षे अद्य प्रधानमन्त्रित्वेन शपथं ग्रहीष्यति

आर्थिक विषयिण्या मन्त्रि मण्डलीय समित्या भारतशिलोत्याद पोतपरिवहन रेलभारवहन उत्तरपूर्वविद्युद्र्जा टिहरीजलविकास सहयोग सम्बद्धेष् निजीयोद्यमेष् निर्निवेश हेतोः स्वीयान्मोदनं प्रदत्तम् एतद विषयिणीं सूचनां च गतदिवसे उक्त समितेः मन्त्रणोप वेशनाद अनन्तरं वित्तमन्त्री निर्मला सीतारामन् वार्ताहरेभ्यःप्रकाशितवती केन्द्रीयमन्त्रिपरिषद् पलाण्ड् देशे उपभोक्तणां कृते पलाण्डोः उप लब्धतां वर्धयित्ं प्रशासनेन प्रायशः सपादैकलक्ष मीट्रिकटन परिमितस्य पलाण्डोः आयातार्थम् अनुमोदनं विहितम् एतद् विषयिणी उद्घोषणा च एतन्मासस्य षोडशे दिनांके केन्द्रीय खाद्योपभोक्त विषय मन्त्रिणा रामविलास पासवानेन विहितासीत्

श्रीलंका प्रधानमन्त्री श्रीलंकायां प्राक्तनः राष्ट्रपतिः नवनिर्वाचित राष्ट्रपतेः गोताबाया वर्यस्य भ्राता च महिन्दा राजपक्षे अद्य प्रधानमन्त्रित्वेन शपथं ग्रहीष्यति ध्यानास्पदमस्ति यत् गत शनिवासरे राष्ट्रपतिपदाय सञ्जातेष् निर्वाचनेष् स्वदलस्य पराजयानन्तर रानिलविक्रमसिंघे वर्येण प्रधानमन्त्रि पदं परित्यक्तमासीत निर्वाचनेष् गोताबाया वर्येण विक्रम सिंहे वर्यस्य दल प्रत्याशी सजित प्रेमदासः पराजितः

अवश्योद्वोष्यम् आकाश वाण्याः वार्ता सेवा प्रभागेण संस्कृते काश्मीर्यां च अनियत वार्ता प्रवाचक सहानुवादक पदे नियोजनाथं आवेदनम् आमन्त्रितमस्ति आगामिनो डिसेम्बर मासस्य षष्ठो दिनांकः आवेदन प्रेषणाय अन्तिमा तिथिर्विद्यते इच्छुकाः अभ्यर्थिनः विज्ञप्तेः विस्तृत विवरणार्थं डब्ल्यू डब्ल्यू डब्ल्यू डॉट न्यूज ऑन एआईआर डॉट कॉम इति अन्तर्जाल स्थानके द्रष्टमर्हन्ति